असम बिहार राज्ययो जलपूर स्थिति चिन्ताकरी वर्तते एन आई ए एन आई ए इति राष्ट्रिय अन्वेषण अभिकरण संशोधन विधेयक प्रर्वतनमान वर्षार्थमद्य लोकसभायां गृह राज्यमन्त्रिणा जी किशन रेड्डी वर्येण प्रस्त्तः

राष्ट्रपति राष्ट्रपतिना रामनाथ कोविन्तेन कालराजमिश्रा वर्य हिमाचल प्रतेशस्य राज्यपाल निय्क्त राष्ट्रपति भवनस्य विज्ञप्त्यां विज्ञापितं यत् आचार्य पेवव्रतं हिमाचल प्रोश त स्थानान्तरित्वा ग्जरातराज्यस्य राज्यपाल निय्क्त

स्रक्षा बलानि तीर्थ यात्रिणां स्रक्षार्थ सर्वविधोपाया क्र्वन्ति केन्द्रीयारक्षितारक्षिबलानां भटा जम्मू कश्मीर राष्ट्रीय राजमार्गे स्रक्षा प्र न्ति हर्षवर्दधन प्रशासनस्य उच्चस्तरीय समितया राष्ट्रिय डिजिटल स्वास्थ्य मिशन इत्यस्य संरचन प्रस्ताव प्रस्तुत स्वास्थ्य मन्त्रिणा डॉ हर्षवर्धनेनाद्य नवशिल्ल्यां राष्ट्रिय डिजिटल स्वास्थ्य समित्या विवरणं प्रस्त्तम्

तत्र बहव नदय संकटचिन्हमतिक्रम्य प्रवहन्ति तत्रत्य अष्टाविंशति जनप ानि षडविंशत्यृत्तर जना जलाप्लावनात् प्रभाविता वर्तन्ते

तत्र द्वात्रिंशत् जना मृता सूच्यन्ते साहय्योदधार कार्याणि तत्र प्रचलन्ति

विशेष न्यायाधीशेन अरविन्ध क्मारेण सक्सेनया आपेशं सम्प्रसार्य प्रकरणस्य श्रवणं ग्रूवासरं स्निश्चितम् अयोध्या अयोध्यायां विवाणित संरचना विध्वंस प्रकरणस्य श्रवणरतेन विशिष्टेन न्यायाधीशेन श्रवणं प्रप्रयित्ं षड् मासात्मक समय अभ्याचनय्ता याचिका अद्य उच्चतम न्यायालये पंजीकृता

उच्चतम न्यायालय कर्णाटके उच्चतम न्यायालय कांग्रेस लस्य पंचान्ये राजद्रोहि विधायकानां याचिका श्रवणं श्व कर्त् सहमत श्व स्श विधायकानां लम्बित याचिकापि श्रोष्यति